कोविड् संचेतना सन्देश प्रिया श्रोतार कोरोना महामारीं विरुध्य देश एकता भावनया युध्यते भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्पं स्वीकुर्वन्त् मुख आवरकं सन्धारयन्त् सामाजिक द्रतां पालयन्तु पाणि पादं च यथा समयं प्रक्षालयन्तु औषधम् अपि सावधानता अपि

यात्राया प्रथमे चरणे स अद्य सायं भ्वनेश्वरं प्राप्स्यति श्व रुड़की नगर स्थे राष्ट्रिय प्राविधिक संस्थाने सअष्टादशं वार्षिक दीक्षान्त समारोहं सम्बोधयिष्यति परश्न तस्य नवदेहलीं प्रति निवर्तनात् पूर्वंकोणार्क यात्राया कार्यक्रम अस्ति पश्चिमबंगालम् नैर्वाचनिकप्रचार निर्वाचन उन्मुखेष् पश्चिम बंगालेष् आद्यस्य चरण द्वयस्य कृते विभिन्नानां राजनैतिक वृन्दानां नैर्वाचनिकानि प्रचार अभियानानि सम्प्रति परा काष्ठां प्राप्नुवन्ति तत्र मेदिनीपुर निर्वाचन क्षेत्रस्य पश्चिमे प्रान्ते यत्र एकत प्रधानमन्त्री श्रीनरेन्द्र मोदी जनसभा सम्बोधयिष्यति तत्र एव अपरत प्र्वीये प्रान्ते तृणमूल कांग्रेस् प्रमुखा सुश्री ममता बनर्जी त्रिष् स्थलेषु तिम्र जनसभा उद्वोधयिष्यति

क्रिकेट् भारत इंग्लैण्डयो मध्ये अन् वर्तमानाया विंशति प्रतिविंशति क्षेप चक्रीयाया क्रिकेट क्रीडा शुंखलाया पञ्चमी अन्तिमा च प्रतिस्पर्धा अद्य गुजराते अहमदाबाद नगरस्थे नरेन्द्र मोदि क्रीडांगणे समा योजयिष्यते इये स्पर्धा साये सप्त वादनात् प्रारब्धा भविष्यति अस्यां शृंखलायां सम्प्रति दल द्वयम् अपि द्वौ द्वौ अंकौ सम्प्राप्य तुल्य बलम् अस्ति

संस्कृत साप्ताहिकी प्रिया श्रोतार सेस्कृत जगता संबद्धैः विभिन्नैः क्रिया कलापैः संबलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्या एफ्एम् गोल्ड प्रवाहिका त अद्य पूर्वाह्ने विंशति कलोत्तरे एकादश वादने भविष्यति अस्य कार्यक्रमस्य पुन प्रसारणं श्व अस्मिन् एवं काले भविष्यति